राष्ट्रपति प्रधानमन्त्रि शोकं अभिव्यक्तवन्तौ प्रधानमन्त्रिणा श्रीनरेन्द्रमोदिना दिल्ल्या मुख्यमन्त्रिणा च मृतकपरिवारेभ्य अनुग्रहराशिप्रदानाय घोषणा विहिता झारखण्डविधानसभाया तृतीयचतुर्थचरणयो निर्वाचनप्रचाराभियानं तीव्रगत्या प्रवर्तते

घन्नियं रानीझांसीमार्गेस्थे अनाजमण्डी इति बृहदान्नापणे जाता प्रधानमन्त्रिणा श्रीनरेन्द्रमोदिना अग्निकाण्डे मृतकान् प्रति गभीरा चिंता व्यक्ता केन्द्रीयगृहमन्त्रिणा अमितशाहेनापि एकस्मिन् िव्री ज़िन्देशे सम्बन्धिताधिकारिभ्य आहतेभ्य शीप्रसौविध्य प्रदानाय निर्देशा प्रदत्ता प्रकरणे अस्मिन् साधेंकशताम्निशामकाधिकारिभि सप्तष्टि जना भवनेभ्य सुरक्षास्थलेष् चिकित्सालयेष् च नीता आहता देहल्या लोकनायकजयप्रकाशनारायण राममनोहरलोहिया हिन्द्रावचिकित्सालयेष् षधालयेष् उपचारार्थं प्रेषिता सन्ति दिल्लीप्रशासनेन अग्निकाण्डस्य शीघ्रान्वेषणाय दण्डाधिकारी निर्दिष्ट दिल्लीमुख्यमन्त्रिणा अरविन्दकेजरीवालेन मृतकानां परिवाराय प्रत्येकस्मै दशलक्षरुप्यकाणां आहतानां प्रत्येकस्मै एकलक्षरुप्यकाणामनुग्रहराशि उद्वोषित घ नास्थले सम्प्राप्नेन केन्द्रीयमन्त्रिणा हरदीपसिंहपुरिणा अपि मृताकानां परिवाराय पञ्चलक्षरुप्यात्मिक अनुग्रहराशि घोषित प्रधानमन्त्रिणा श्रीनरेन्द्रमोदिना अपि प्रत्येक मृतकस्य निक ठिमपरिजनाय प्रधानमन्त्रिराष्ट्रियापत्साहाय्यकोषात् द्विलक्ष रुप्यात्मिकअनुग्रहराशिप्रदानाय घोषणा विहिता सहैव तेन अम्निकाण्डे गम्भीरतयाहतानां जनानां कृते पञ्चाशत्सहम्र रुपयकाणां राशि समुद्घोषित राष्ट्रपति राष्ट्रपतिना श्रीरामनाथकोविन्देन अद्य ओडिशायां पाइका विद्रोहस्य द्विशतवर्ष पूर्त्यवसरे एकस्य स्मारकस्य आधारशिला स्थापिता सप्तदशोत्तराष्टादशततमे वर्षे आंग्लशासकानां विरोधे पाइकाविद्रोह प्राय प्रथमस्वतन्त्रतासंग्राम इति आमान्यते स्मारकोऽयं खुर्दाजनपदस्य बारुनेई पर्वतशिखरे विनिर्मास्यते

झारखण्ड विधानसभानिर्वाचनम् झारखण्डविधानसभाया तृतीयचतृर्थचरणयो निर्वाचनप्रचाराभियानं तीव्रगत्या प्रवर्तते तृतीयचरणाथे अष्ट जनपदानां सप्नदशासनाना कृते अस्य मासस्य द्वादशे दिनांके मतदानानि विधास्यन्ते अपरे च चतुर्थे चरणे चतुर्जनपदाना पञ्चदशनिर्वाचनक्षेत्रेषु मासस्यास्य षोडशे दिनांके मतदानं भविता प्रधानमन्त्री श्रीनरेन्द्रमोदी भाजपा प्रत्याशिनां समर्थने श्व बोकारो इत्यत्र जनसभामेकां सम्बोधयिष्यति उन्नावपीडिता अद्य उत्तरप्रदेशे उन्नावदृष्कर्मपीडिया पैत़कप्रामे पूर्णस्रक्षासहिता तस्या अन्तिमसंस्कारक्रिया जाता प्रसंगेऽस्मिन् अनेकजनसहिता आरक्ष्याधिकारिण प्राशासनिकाधिकारिणथ्व समवेता आसन् राज्यस्य श्रमाजीविकामन्त्रिणा स्वामिप्रसादमौर्येण प्रोद्यौगिकी शिक्षामन्त्रिणा कमलरानीवरुणया सह च पीडिताया पारिवारिकै सह मेलनमपि कृतम् राज्यप्रशासनेन पीडितपरिवाराय ह्य रात्रौ पञ्चविंशतिलक्षरुप्यात्मिकम् आर्थिकसहाय्यमपि प्रदत्तम् जम्मूकश्मीर ऋतु जम्मूकश्मीर भौमवासरं यावत् ऋत् श्ष्कायित भविता इति ऋत्विभागीयम् अन्मानं वर्तते श्रीनगरकश्मीरयो रात्रौ तापमानम् शून्यात् अपि अपचितम्